कोविड संक्रमणं निध्याय प्राशासनिक मानकानुग्ण शपथग्रहण समारोहायोजनं भविष्यति

इतः प्राक् गतदिने श्री सरमा सर्वसम्मत्या विधायकदलस्य नेता प्रचितः

कोविड स्थितेः समीक्षा प्रधानमन्त्रिणा नरेन्द्रमोदिना विगतेहिन पञ्जाब कर्नाटक बिहारोत्तराखण्डचेति राज्यचतुष्टयस्य मुख्यमन्त्रिभिः सह संवादं विधाय कोविड स्थिते समीक्षिता विगतेष् दिनेष् प्रधानमन्त्रिणा अन्यराज्याणां मुख्यमन्त्रिभिः साकं विषयेस्मिन् चर्चा कृता स्वास्थ्य सम्बद्ध सौविध्यं सूच्यौषधाभियानस्य च स्थितिः परिज्ञाता प्रधानमन्त्री इतः प्राक् तमिलनाडोः झारखण्डस्य ओडिसायाः तेलङ्गानायाः महाराष्ट्रस्य मध्यप्रदेशस्य सिक्किमस्य च मुख्यमंत्रिभिः सह संवाद कृतवान्

सामाजिकायोजनानि मैट्रो रेलसञ्चालनं च पूर्णतया प्रतिबन्धितानि देहलीम् अतिरिच्य उत्तर प्रदेशे कर्णाटके मिजोरमे उत्तराखण्डे केन्द्र शासिते जम्मू कश्मीरे च पिधानावधिः समेधितः

आयुष मन्त्रालयेनोक्तं यत् निजगृहेषु अथ च प्राशासनिक संस्थानेष् उपचर्यमाणेभ्यः नूतनकेन्द्रेभ्यः लाभावाप्तिः भविष्यति संक्रमित जनस्य कोविड परीक्षणस्य पत्रम् आधारपत्रं च प्रस्तूय निशुल्कौषधिः प्राप्स्यते

सङ्क्रमणस्य प्रभावम् अन्तरा भारतेन वैश्विकं साहाय्यं प्राप्यते केन्द्रेण च वैश्विक साहाय्यं राज्येष् प्रापयित् प्रभावपूर्णा व्यवस्था निर्मीयते